प्रधानमन्त्री नेपाल प्रधानमन्त्री नरेन्द्रमोदी नेपालस्य प्रधानमन्त्री के पी शर्मा ओली च अद्य वीडियो कॉन्फ्रेंसिंग इति दृश्यसंचारमाध्यमेन मोतीहारी अमलेखगंज शिलातैल वाहिकाम् उद्घाटथिष्यत प्रधानमन्त्री कार्यालयेन एकास्मिन् ट्वीट सन्देशे प्रतिपादितं यत् ऊर्जासहयोगपरियोजना देशद्रयस्थ सुदृढ़सम्बन्धानां प्रतीकस्वरूपा विद्यते मोतीहारी अमलेखगंज परियोजना भारतेन निर्मातास्ति मन्त्रिण राष्ट्रीयजनतान्त्रिक संयुति प्रशासनेन प्रधानमन्त्रिण नरेन्द्रमोदिन नेतृत्वे द्वितीयकार्यकालस्य प्रथमशतं दिनानि पूर्णानि कृताति एतेष् दिनेष् ऐतिहासिक पदक्षेपा प्रशासनेन विहिता अत्रावसरे विविधकेन्द्रीयमन्त्रिभि देशस्य विविधनगरेष् प्रशासनस्य निर्णयोपलब्धय विज्ञापयित् वार्ताभिकरणानि सम्बोधितानि वित्तमंत्री निर्मलासीतारमण चेनव्यां विधिमन्त्री रविशंकप्रसाद अहमदाबादे वस्त्रोद्योग मन्त्री स्मृति ईरानी कोलकातायां संसदीयकार्यमन्त्री प्रहलादजोशी च गोवायां सम्बोधनं कृतवन्त आरके सिंह केन्द्रप्रशासनेन समुद्धोषित यत् शीघ्रमेव विद्युद्पभोक्तृणा रक्षायै विधेयक निर्मास्यति

अम्नोक्तं यत् विधेयकस्य अन्तर्गतम् उपभोक्तार स्वेच्छया विद्युत्सौविध्यप्रदातृ समवायानां चयनं कुर्तु शक्यन्ते

विषयेऽस्मिन् केन्द्रीयान्वीक्षणाभिकरणेन प्रोक्तं यत् भ्रष्टाचारस्य प्रकरणे वित्तीयदानप्रदानविषये अभिकरणं स्पष्ट ज्ञानं वाव्छति

राष्ट्रपति राष्ट्रपति रामनाथकोविन्द अवादीत् यत् इसलैंड देश भारतस्य विश्वसनीय मित्रं वर्तते

यत्र भारतं संयुक्त अरब अमारातेन सह मिलित्वा सहायोजन करोति सम्मेलने परिवर्तन युगे एशियाया विश्वस्य च विकासार्थं ऊर्जा सुरक्षा विषये चर्चा भविष्यति मुष्टामुष्टि रूसदेशस्य एकातेरिनबर्गनगरे प्रवर्तमानायां पुरुषाणां विश्वचषक मुष्टामुष्टि स्मर्धायां भारतम् अद्य स्वीयाभियानं प्रारप्स्यति एकाशीति किलोग्रामभारवर्गे बृजेशयादव भारतस्य अभियान प्रारप्स्यति स्पर्धाया सप्ताशीति राष्ट्राणा सार्ध चतुशताधिकक्रीडका सहभागं कुर्वन्ति